स्वास्थमंत्री हर्षवर्धन अद्य उत्तरप्रदेश आंधप्रदेश मध्यप्रदेश गुजरातराज्याणां स्वास्थ्यमंत्रिभि सह उपवेशनं विदधाति देशे कोविड संक्रमण प्रकरणेष् नैयून्यं दरीदृश्यते प्रत्यवाप्तिमिति अष्ट त्रि दशमलवोत्तर द्वयाशीति प्रतिशतं यावत् विवर्धिता देशे साम्प्रतं यावत् अष्टादश कोटितोप्यधिकानि कोविड नवदश सूच्यौषधानि वितरितानि सन्ति अपि च देशस्य विभिन्न क्षेत्रेष् द्रव्यरूपकं प्राणवायु सौविध्यं प्रापयति रेलविभागः रेलविभागेन गत विंशतिःव दिवसेषु विभिन्न राज्येषु नवशतोतर सप्तसहस टन मितं तरल प्राणवायु सौविध्यम् प्रापितं कोविड्सन्देश प्रिया श्रोतारः समस्तेऽपि देशे पुनः समेधमानेन विकराल कोरोना संक्रमणेन जनसामान्या भयाक्ला दरीदृश्यन्ते अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीकुर्वन्त् असावधानता नैव आचरन्त्

म्खावरकं सन्धारयन्त् दैहिक दौर्यम् परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

विगतकतिपयेष् दिनेष् श्रीमोदिना निरन्तरं कोरोनास्थितिविषये राज्यानां मुख्यमन्त्रिभि समं संवाद क्रियते सद्य प्रवृतेऽस्मिन् उपवेशने अम्ना अध्यक्षतां क्वन् स्थिते पर्यवेक्षणं कृतम् अस्मिन् उपवेशने प्रधानमन्त्रिण सचिव गृहमंत्रालयादि विभागानां सचिवा वरिष्ठ अधिकारिणश्च सम्पस्थिता आसन् अद्यैव सायंकाले असौ सम्भावितचक्रवातस्य उपशमने कृतसज्जतां आलक्ष्य महत्वपूर्णम् उपवेशन् विधास्यति उपवेशने सर्वकारस्य वरिष्ठ अधिकारिण राष्ट्रीय आपदा प्रबंधन प्राधिकरणस्य विशिष्टा अस्मिन अधिकारिण राष्ट्रीय आपदामोचनबलस्य सदस्या भागं ग़हिष्यन्ति स्वास्थ्यमंत्री हर्षवर्धन स्वास्थमंत्री हर्षवर्धन अद्य उत्तरप्रदेश आंध्रप्रदेश मध्यप्रदेश गुजरातराज्याणां स्वास्थ्यमंत्रिभि सह उपवेशनं विदधाति उपवेशनेऽस्मिन् असौ एतेष् राज्येष् कोविडमहामार्या स्थिते अपि च कोविडसूच्यौषध अभियानस्य प्रगते समीक्षाम् आलक्ष्य चर्चा विधास्यति

कोरोना सम्पृष्ट जनानां संख्यायां सततं अपचिति प्राप्यते स्वास्थ्य परिवार कल्याण मंत्रालयेन विज्ञापितं यत् समेकित संक्रमितेष् जनेष् षोडशदशमलव पञ्च द्विप्रतिशतं जनाः साम्प्रतं उपचाराधीना सन्ति मंत्रालयेन एतदपि विज्ञापितं यत् देशे चत्ःपञ्चाशत् सहस्राधिक सप्तत्रिंशत् लक्षाधिकः जनाः संक्रमिता सन्ति देशे विगतेष् दिवसेष् प्रतिदिनं त्रिलक्षाधिका जनाः संक्रमणमुक्ता सञ्जाता देशे साम्प्रतं प्रत्यवाप्तिमिति अष्ट त्रि दशमलवोतर द्वयाशीति प्रतिशतं यावत् विवर्धिता मन्त्रालयेनोक्तं यत् विगतासु चतुर्विशतिहोरासु त्रिपञ्चाशत् सहस्राधिक त्रिलक्षाधिका जनाः स्वस्थीभूताः अभूवन् देशे अध्ना पर्यन्तं षडाशीति लक्षाधिक एककोटितोप्यधिका जनाः अस्मात् रोगात् विमुक्ता हयः षड्षष्ठि सहस्रोत्तर त्रिलक्षाधिक नूतन प्रकरणानि पञ्जीकृतानि चतुःपञ्चाशदधिक सप्तशतोत्तर त्रिसहस्न जनाः कालकवलिता सूच्यन्ते आहत्य देशे षट्चत्वारिंशत् सहस्राधिक द्विलक्षाधिक जनाः कालकवलिता भारतीयायुर्विज्ञान चिकित्सा परिषदनुसारि विगते अहोरात्रे चतुस्सप्तति सहस्राधिक चतुर्दशलक्षाधिकानि कोरोना प्रतिदर्शपरीक्षणानि समनुष्ठितानि

एतेष् सप्तविंशतिः सहस्राधिक षण्णवतिलक्ष स्वास्थ्यकर्मिण कोरोना प्रतिरोधि सूच्यौषधस्य प्रथम चरणानन्तर्गतं एतत् सूच्यौषधं स्वीकृतवन्तः अथ च षड्षष्ठिलक्षाधिक स्वास्थ्यकर्मिण कोरोना प्रतिरोधि सूच्यौषधस्य द्वितीय चरणानन्तर्गत एतत् सूच्यौषधं स्वीकृतवन्तः

रेलमंत्रालय देशस्य विभिन्न क्षेत्रेष् द्रव्यरूपकं प्राणवाय् सौविध्यं प्रापयति रेलविभागः

वाणिज्य एवं उदयोगमंत्रिणा पीयूष गोयलेन अमेरिकादेशस्य व्यापारप्रतिनिधिदत कैथरीन तेई इत्याख्येन सह दृश्यश्रव्यप्रणाल्या माध्यमेन कोरोना सूच्यौषधे उत्पादनवद्धीनां विषये विचार विमर्श प्राचलत् गतदिने प्रवृत्तायां चर्चायां विशेषेण वैश्विकमहामारीम् उपशमने सृच्यौषधिउपलब्धताविषये वार्तालापा संजाता कजाकिस्तान कजाकिस्तानदेशेन भारतस्य सहयोगाय प्रेषितानि चिकित्सा उपकरणानि अदय भारतं सम्प्राप्तानि

एतदन्तराले विदेशमंत्रालयेन सुचितम यत अदय प्रातः मुम्बईसम्प्राप्तस्य ऊनत्रिंशत्सहस्राधिकरेमदेसिविरचिकित्सा उपकरणानि पारितोषिकत्वेन प्रदानाय अमेरिकीयबायोफार्मास्य्टिक उद्योगाय धन्यवाद ज्ञापित